मन्त्रिमण्डलोपवेशनम् केन्द्रप्रशासनेनाद्य स्वीय कर्मकारेभ्य सेवानिवृत्त पेंशनावाप्तेभ्यश्च जनेभ्य महार्घतावेतने प्रञ्चप्रतिशतस्य वृद्धे उद्वोषणं विहितम् अद्य नवदिल्यां प्रधानमन्त्रिण आध्यक्षे सम्पन्ने केंद्रीयमन्त्रिमण्डलोपवेशने नैके महत्त्वाधायि निर्णया विहिता अनन्तरं वार्ताभिकरणै समं सम्भाषमाणेन सूचनाप्रसारण मन्त्रिणा प्रकाशजावडेकरेण भणितं यत् दीपावल्यां कर्मचारिभ्य प्रदेयोपहारत्वेन प्रशासनेन महार्घतावेतने वृद्धे उद्घोषणा कृतास्ति राजनाथसिंह वायुसैन्यशक्तिम् अद्यान्वितुं क्रीतेषु फ्रांसनिर्मितेषु षट्त्रिशत्राफेल इति युद्धोपयोगिविमानेषु प्रथमं विमानं रक्षामन्त्रिणा राजनाथसिंहेन अधिगतम् अनन्तरं फ्रांसस्य मेरिन्याके वार्ताभिकरणै समं सम्भाषमाण श्रीराजनाथसिंह न्यगदत् यत् भारतं यथावश्यक तदीयां सैन्यशक्तिक्षमताम् भूयोपि सबलयित्तं रक्षोपकरणानि शस्त्रास्त्राणि चेति क्रीणाति नास्त्यत्र कथ्चित् भयावह सन्देश अवधेयास्पदमिदम् यत् गतदिने अनौपचारिकरूपेणाधिगतस्य प्रथम राफेलविमानस्य शस्त्रपूजं विधाय उड्डयन यत्रापि विहिता चीनराष्ट्रपति चीनदेशस्य राष्ट्रपति षी चिनफिंग द्वि दिवसव्यापन्यै यात्रायै श्क्रवासरे भरतं समायाति असौ तत्रत्येन कम्युनिस्ट पर्टीतिदलस्य पोलितब्यूरोसदस्येन अथ तद्विदेशमन्त्रिणा वांग यी इत्यमुना च सहकृतो भविता स चैन्नैनगरे समनुष्ठीयमाणे अनौपचारिक शिखरोपवेशने प्रधानमन्त्रिणा श्री नेंद्र मोदिना समं सहभागं विधास्यति

अधिकारिक सुचना नुसारम् ऐषम शिखरसम्मेलनस्योद्रेश्य देशयोर्मिथ सम्बन्ध सुद्रढीकरणं सामरिक विषयेष् विचारादान प्रदानं च विद्यते जम्म्कश्मीरम् जम्मूकश्मीरे दशाधिक त्रि शतं विकासखण्डेष् प्रखण्डविकास परिषदाध्यक्षाणां निर्वाचनाय नामांकन पत्रावेदनस्याद्य अवसानदिनम् आसीत् एतदन्वीक्षणकार्यं श्वो विधास्यते नामप्रत्यवर्तनाय शुक्रवासं सुनिधितमस्ति मतदानं च राज्ये ऐषमो चत्र्विंशे दिनांके प्रात नववादनात् एकवादनं यावत् समनुष्ठास्यते अपस्त्र जम्मूकश्मीर प्रदेश कांप्रेस समिति निर्वाचनस्य बहिष्कारनिर्णय विहितोऽस्ति दलप्रवक्ता रविन्द्र शर्मा न्यगदत् यत् प्रशासनस्य असहयोगभृत व्यवहारात् घाट्या वरिष्ठ कांप्रेसनेतृणां निग्रहणकारणाच्च तदीयदलेन निर्वाचनस्य बहिष्करणनिर्णयो विहित